देशव्यापि कोरोना सूच्यौषधाभियानान्तर्गतं साम्प्रंत यावत् भूयोपि नवविंशति सहस्राधिक विंशति लक्षमिता लाभार्थिन सूच्यौषधं प्राप्तवन्त संसद आय व्यय पत्रक सत्रस्य सुचारू संचालनाय राज्यसभाया सभापतिना अस्य मासस्य एकत्रिंशे दिने सर्वदलीयोपवेशनं आहतमस्ति अमेरिका प्रशासनेन निज नागरिका पाकिस्तान बांग्लादेश अफगानिस्तानेति त्रयाणां देशानां यात्रायाम् पुनर्विचाराय परामृष्टा द्बई नगरे आई सी सी प्लेयर ऑ द मंथ इति प्रतिमासं सर्वश्रेष्ठ क्रिकेट् क्रीडक सम्मान प्रदानस्य उदघोषणा कृता

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीक्वन्तु मुखावरकं सन्धारयन्त् सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्त् सच्चौषधम स्वास्थ्य परिवार कल्याण मन्त्री डॉ हर्षवर्धन अब्रवीत् यत् कोरोना सूच्योषध अभियानस्य कार्यक्रम विषये सूचनानां सत्य प्रचार प्रसाराय विभिन्न पक्षै सम्भूय कार्याणि कर्त्तव्यानि अमुनोक्तं गतवर्ष सुच्यौषधान्वेषणाय अभिजास्यते अपि च जगत सम्मुखं निराश्रितेभ्य सूच्यौषध प्रदानस्य समाहवानं सर्वाधिकं महत्वं धते स्वास्थ्यमन्त्री विश्व स्वास्थ्य संघटनस्य संचालन मंडलस्य अष्ट चत्वारिंशदुत्तर शत तमस्य उपवेशनस्य अध्यक्षतां करोति स्म डॉ हर्षवर्धनेन महामारि कारणेन जनिते समस्यावधौ जगत भृशं प्रगति उत्साहप्रदा उदीरिता सममेव असौ न्यगादीत यत कोरोनोन्मुलने प्रकोप नियन्त्रणे च सामुहिक अभियानात्मक प्रयासा महत्सहायका अवर्तन्त

अत्रान्तरे महामार्या प्रकोप समये विश्व स्वास्थ्य संघटनस्य सदस्य देशानां भूमिकापि स्वास्थ्य मन्त्रिणा प्रशंसिता प्रोक्तं संघटनस्य सदस्य देशानां अदभुत संकल्पेन परिश्रमेण च नैकेषां जीवनं परित्रातम् संक्रमिताना निस्वार्थ भावेन उपचार क्वद्भ्य मृत्युम्पगतेभ्य चिकित्सकेभ्य तेन श्रद्धाजलि समर्पित कोरोना सूच्यौषध स्थिति प्रशासनं ब्रूते यत् देशव्यापि कोरोना सूच्यौषधाभियानान्तर्गतं साम्प्रंत यावत् भूयोपि नवविंशति सहस्राधिक विंशति लक्षमिता लाभार्थिन सुच्यौषधं प्राप्तवन्तः

समयेन कार्याचरणस्य क्रियान्वयन कारणं हि संक्रमितानां संख्या अन्दिनं अपचीयते कोविड देशे कोरोना संक्रमितानां स्वस्थताप्रतिशतता समेध्य षण्णवतिदशमलव नवएक परिमिता संवृता विगते चत्र्विंशति होरावधौ त्रयोदश सहस्रतोप्याधिका रोगिण आरोग्यम् प्राप्तवन्त स्वास्थ्य मंत्रालयान्सारं नवपंचाशत्सहस्राधिक त्रि लक्षोत्तर एक कोटि जना प्रागेव चिकित्सालयेभ्यो विमुक्ता तंत्रैव देशे संक्रमितानाम् सक्रिया संख्या प्राय पंचशताधिक षटसप्तति सहस्रोत्तर एकलक्ष्य मिता वर्तते विगते अहोरात्रे सप्तत्रिंशदुत्तर शतं रोगाक्रान्ता जना प्राणान् अत्यजन्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 वेंकैया नायड् संसद आय व्यय पत्रक सत्रस्य सुचारू संचालनाय राज्यसभाया सभापतिना एम वेंकैया नायड्र वर्येण अस्य मासस्य एकत्रिंशे दिने सर्वदलीयोपवेशनं आहतमस्ति लोकसभाध्यक्ष ओम बिरला अपि श्क्रवासरे सर्वदलीयोपवेशनम् आहवयिष्यति इति संभाव्यते

ततः प्राक् ऊनविंशे दिने राष्ट्रपति रामनाथ कोविंदः सदनदवयस्य संय्क्तोपवेशनं संबोधयिष्यति

अन्ताराष्ट्रिय मुद्रा अन्ताराष्ट्रिय मुद्रा कोषेण अस्मिन् वर्षे भारतस्य विकास दर प्रतिशतं एकादश दशमलव पंच परिमित भविष्यति इति अनुमानित अनुमानमिदं यदि सत्यतां यास्यति चेत कोरोना संक्रमणस्य संकट कोलेऽस्मिन् भारतं जगत एकमात्रं तादृशं राष्ट्रं भविष्यति यस्य वृदधिदरः दशाधिकं भविष्यति अनेन पूनरेकवारं भारतं सर्वाधिकं विकासमानं अर्थव्यवस्थायूतं राष्ट्रं भविष्यति अस्य मासस्य प्रारम्भे कोषस्य प्रबन्धनिदेशक क्रिस्टालिना जॉर्जीवा अवोचत् यत् भारतेन कोरोना अथ च अर्थव्यवस्थायां अस्य प्रभावं निराकर्त् प्रबलं कार्याचरणं विहितम् दिल्ली आरक्षिबनं राजधान्यां नवदिल्ल्यां कृषकाणां क्रोध प्रदर्शनस्य समये हिंसक घटनानन्तरं दिल्ली आरक्षिबलेन विधे उल्लंघनं हिंसाचरणं सार्वजनिक संपत्ते हानि घातकास्त्राणाम् प्राशासनिक अधिकारिष् आक्रमणस्य आरोपे च चत्र्विशति प्राथमित्यः पंजीकृता दिल्ल्यारक्षिबलं च स्थिते निरीक्षणं विदधाति कृषकाणां ट्रैक्टर रैली इति वाहनयात्रा प्रदर्शनावसरे आरक्षिणां कृषकाणां च मध्ये गतदिने अनवरतं संघर्ष प्रवर्तित अत्रान्तरे दिल्ली आरक्षिदलस्य आयुक्तेन एस एन श्रीवास्तवेन आन्दोलनकारिण हिंसाचरणं अपहात्म् प्रोक्ता अम्ना शान्ति प्रवर्तनाय अध्यर्थना कृता अवधेयं अस्ति यत् हिंसक प्रदर्शनानि मुकरबा चौक गाज़ीप्र आई टी ओ सीमापुरी नांगलोई टीकरी बॉर्डर रक्तद्वर्ग इत्याख्येष् क्षेत्रेष् अवर्तन्त इदानीं यावत् हिंसक प्रदर्शनेष् षडशीति आरक्षिण व्रणिता सूच्यन्ते नैके च उपचार्यमाणा सन्ति क्रिकेट अन्तार्राष्ट्रिय क्रिकेट् परिषदा अद्य द्बई नगरे आई सी सी प्लेयर ऑ॰ द मंथ इति प्रतिमासं सर्वश्रेष्ठ क्रिकेट् क्रीडक सम्मान प्रदानस्य उद्घोषणा कृता अनेन प्रस्कारेण अन्ताराष्ट्रिय क्रिकेट् स्पर्धास् सर्वश्रेष्ठ प्रदर्शनाय महिला प्रूष वर्गयो क्रीडका सम्मानयिष्यन्ते एकस्मिन् वक्तव्ये अन्ताराष्ट्रिय क्रिकेट् परिषदा प्रोक्त यत् क्रीडकाना चयन मतदानेन विधास्यते